परीक्षा पे चर्चा प्रधानमन्त्री प्रावोचत् यत् विद्यार्थिभिः अभिभावकैः च परीक्षाः जीवनान्तत्वेन न द्रष्टव्याःअपित् सर्वदा एव उत्तमान् प्रयासान् विधाय भविष्यति भद्रतरप्रदर्शनं विधात्ं प्र यतितव्यम्

श्रीमता मोदिना उक्तं यत् अभिभावकाः न कथमपि सन्ततिष् आपीडं वर्धयेय्ः

श्रीमता मोदिना शिक्षकाः आग्रहीताः यत् ते छात्रान् समय प्रबन्धनाय निर्दिशेय्ः प्रधानमन्त्रिणा छात्राः निर्दिष्टाः यत् तैः परीक्षायां सर्वादौ सरल प्रश्नाः समाधेयाः अपि च स्वस्य कृते दिने कश्चन समयः अवश्यं भवेत् यत्र मनोरञ्जनादिकं कृत्वा चिन्तामुक्तिः स्यात् प्रधानमन्त्री सेशेल्स् प्रधानमन्त्री नरेन्द्र मोदी सेशेल्स् राष्ट्रपतिः वैवेल रामकलावनश्च संयुक्त रूपेण अद्य सेशेल्से भारतीय परियोजनानाम् एकस्याः शंखलायाः दृश्य श्रव्य संवाद तन्त्र माध्यमेन उद्घाटनं विधास्यतः कोरोना स्थिति केन्द्रीयः स्वास्थ्यमन्त्रालय असूचयत् यत् साम्प्रतं यावत् देशे प्राय त्यशीति लक्षोत्तर अष्टकोटि लाभार्थिभ्य सूच्यौषधानि प्रदत्तानि मन्त्रालयेन उक्तं यत् गतरात्रौ अष्टवादनं यावत् चतुर्दश सहस्राधिक त्रयोदश लक्षाधिकाः जनाः सूच्यौषधिं प्राप्तवन्तः अपरत्र राष्ट्रे विगतासु चतुर्विंशतिहोरासु षट्रिंशद्तर सप्तशताधिक पञ्चदश सहस्रोत्तरैकलक्ष संख्याकानि नूतनानि विषाणो प्रकरणानि समक्षम् आगतानि अनेन सहैव देशे इदानीं यावत् संक्रमितानां कुलसंख्या समेध्य पञ्चाशीत्युत्तर सप्त शताधिकैक सहस्रोत्तर अष्टाविंशति लक्षाधिक एककोटि मिता संवृत्ता